कोविड ओपनिंग प्रियाः श्रोतारः कोविड नाइन्टीन इति वैश्विक संक्रमणं विरुध्य राष्ट्रं ऐक्यभावनया युध्यते भवन्तोऽपि संक्रमणं इद परास्त् सन्नद्वाः भवन्त् मुखनासिकाच्छादकं सामाजिकदौर्यान्पालनं पाणिपाद प्रक्षालनञ्च इति उपायत्रयं सर्वदैव अवधारयन्तु यतोहि यावन्न औषधं तावन्न शैथिल्यम्

शीर्षन्यायालयेन प्रशासनं कृषकसंघटनानि च अन्तरा गतिरोधापाकरणाय विशेषज्ञानां समितिरेका अस्ति संघटिता उच्चन्यायालयेन प्रोदितं यत् तद्धि समस्याया समाधानाय प्रयासरतो वर्तते अपि च न्यायालय विधे निरसनशक्तिमपि सन्धत्ते मुख्यन्यायधीशो एस् ए बोबडेवर्यस्य आध्यक्षपीठने स्पष्टीकृतं यत् ये वास्तविकरूपेण विषयेऽस्मिन् गतिरोधम् अपाकर्त् इच्छति ते निश्चप्रचमेव समित्या समक्षं विचारविनिमयाय उपस्थास्यन्ते इति ब्रेक इद संस्कृतवार्ता प्रसारणम् आकाशवाणीतः प्रसार्यते

केन्द्रीय स्वास्थ्यमन्त्रालयेन संसूचितं यत् केन्द्रप्रशासनं एतदभियानाय सर्वै राज्यप्रशासनै साकं सन्ततं सामञ्जस्य संस्थापयदस्ति नवदिल्ल्यां वार्ताहरसम्मेलनं सम्बोधयन् स्वास्थ्यसचिव राजेशभूषणो अवादीत् यत् राज्यानि अपेक्ष्यमाणानि सन्ति यत् तै सूच्यौषधाभियानाय अस्मै सर्वतोदृशा सज्जता परिपालयिष्यन्ते

अभिनवशिक्षानीतौ यूना विचाराणां चिन्तनशक्तेश्व वर्धनाय प्राथमिकता सन्ति उपकल्पिता अवधेयास्पदं तथ्यमिदं यत् प्रधानमन्त्री नरेन्द्रमोदी ह्य दृश्य श्रव्य परान्तर्जालीय माध्यमेन राष्ट्रियय्वसंसद समापनसत्रं सम्बोधयन् अवादीत् यत् राष्ट्रनिर्माणदिशि अभिनवशिक्षानीतिपरो निर्णयो वर्तते महत्वपूर्ण अमुना न्यगादि यत् प्रशासनेन तादृशं वातावरणं निर्मीयते येन हि युवान उचितावसरं प्राप्नुयु

देशे संक्रमणात् प्रत्यवाप्निमिति चत्वारि नव दशमलवोत्तर षण्णवतिमितास्ति सब्जाता